प्रधानमन्त्री राम मन्दिर विषयमवलम्ब्य निराधारं विवादास्पदवक्तव्यं प्रसारयन्तो वास्तव्या प्रधानमन्त्रिणा देशस्य न्यायालयी कार्यप्रणालीं प्रति विश्वसित् प्रोदीरिता अम्नोक्तं यत् रामजन्मभूमि बाबरी मस्जिदभू प्रकरणं यथाशीघं समाधात्म् शीर्षन्यायालयेन वादश्रवणाय अतिरिक्त षड्दिवसावधि अपि वर्धित प्रधानमन्त्री महाराष्ट्रस्य नासिकस्थे तपोवने मुख्यमन्त्रिण देवेन्द्र फणनवीसस्य महाजनादेशयात्राया विजय संकल्प जनसभां सम्बोधयति स्म अत्रान्तरे अम्ना तत्प्रशासनेन देशोन्नतये कृतकर्माणि अपि सम्पवर्णितानि

अध्यादेशोऽयं केन्द्रीय मंत्रिमण्डलेन गतदिने अनुमोदितमासीत् एतदनुग्णं कथंकारकमपि ध्रम्प्रवर्तिकाप्रयोगं दण्डनीयं अवर्तत अवधेयास्पदं वर्तते यत् वित्तमंत्रिण आध्यक्षे समाचरितोपवेशने युवसु वैद्युदीय धूम्रवर्तिका दृष्प्रभावं निधाय निर्णयोऽयं विहित एतद्विषयकं विधेयकं संसद अग्रिमसत्रे प्रस्तोष्यते शीर्षन्यायालय उच्चन्यायालये सेवारता सचत्वारो न्यायाधीशप्रम्खा शीर्षन्यायालये न्यायाधीशपदे नियुक्ता सम्प्रति उच्चतमन्यायालये न्यायाधीशानां संख्या समेध्य चत्स्त्रिंशत् जाता सर्वेडपि नवनिर्वाचिता न्यायाधीशा पञ्जाब हरियाणा हिमाचलप्रदेश राजस्थान केरलेति राज्यानाम् उच्चन्यायालयेष् न्यायाधीशप्रमुखत्वेन सेवारता आसन् जम्म् कश्मीरम् कश्मीरोपत्यकाया सर्वेभ्योजप क्षेत्रेभ्य प्रतिबन्धा अपाकृता उपत्यकाया पञ्चोत्तरैक शत स्थात्रेष् द्विनवतिस्थात्राणि वीतप्रतिबन्धानि स्थिर वाक् सेवा पूर्णतया प्रत्य्त द्रवाक्सौविध्यं नैकेष् क्षेत्रेष् संचालिता तत्रैव कश्मीर जम्मू लददाखस्य जनपदेष् प्राशासनिक भूमे उपलब्धता समीक्षित् बीवीआर स्ब्रह्मण्यम् जम्मूकश्मीरस्य मुख्यसचिव निर्दिष्ट